रक्षामन्त्रिणा राजनाथ सिंहेनोक्तं यत् हस्तक्षेप नैव कर्तु सिद्धान्तोऽयम् अनुपालयन् पारस्परिक भावना अवगम्य वि क्षेत्रीय शान्ते स्थापना भवितुं शक्नोति झारखण्डस्य राज्यपालेन द्रौपदी मुर्मू वर्यया रांच्या राजभवने हेमन्त सोरेन वर्यस्य नेतृत्व युते राज्य मन्त्रिमण्डलेडद्य सप्त मन्त्रिण पद गोपनीयतायै शपथं अंगीकारितम् प्रधानमन्त्री एनसीसी प्रधानमन्त्रिणा नेरेन्द्रमोदिना प्रोक्तं यत् तदीय प्रशासनं नागरिकता संशोधन विधेयकम् ऐतिहासिक न्याय स्तरे सुसिद्धयर्थं भाजपादलं च अल्पसंख्यक प्रतिवेशि देशभ्य कृते कृतसंकल्पं विद्यते श्रीनरेन्द्रमोदिना भणितं यत् युवा भारतदेश आतंकवादं सम्मुखीकरिष्यति नवदिल्ल्यामद्य करिअप्पा पदयात्रा प्रांगणे राष्ट्रिय कैडे कोर सीसी इत्यस्य सदस्या सम्बोधयन् असौ प्रतिपादितवान् यत् वर्तमान प्रशासनेन कश्मीरस्य आतंकवादत विमुक्ती कृतम् प्रधानमन्त्रिणोदीरितं यत् कश्मीर देशस्य आभूषणं वर्तते तेन युवजना अध्यर्थिता यत परिवर्तने विलम्बं न कुर्य

तेनेतदप्यक्तं यत् पाकिस्ताने अल्पसंख्यकेष् आक्रमणानि भवन्त्येव बालिकानां बलात् धर्मान्तरणमपि जायते पाकिस्तानं छद्यरीत्या युद्धं युध्यते

प्रधानमन्त्री आल्कम् प्रधानमन्त्री नरेन्द्रमोदी भणितवान् यत् प्रशासनं द्वाविंशत्युत्तर द्विसहस्रतम् वर्षं यावत् कृषकाणाम् आय द्विग्णीकर्त् परिष्कारात्मक उपायेष् कार्यमाचरति गुजरात राज्यस्य गांधीनगरे तृतीय वैश्विक आलुक सम्मेलनं दृश्य श्रव्य सम्भाषणेन सम्बोधयता श्रीमोदिना प्रोक्तं यत् केन्द्रेण खाद्य प्रसंस्करण क्षेत्र विवर्धयितुं बहव उपाया विहिता तेन भणितं यत् मासेऽस्मिन् ष क्रिोर्ट कृषकाणां बैंकागारेषु द्वादश सहस्र कोर्डि रूप्यकाणां स्थानान्तरण लक्ष्यं स्थापितम् राजनाथ रक्षामन्त्रिणा राजनाथ सिंहेनोक्तं यत् हस्तक्षेप नैव कर्त् सिद्धान्तोऽयम् अनुपालयन् पारस्परिक भावना अवगम्य वि क्षेत्रीय शान्ते स्थापना भवित् शक्नोति उच्च्तम न्यायालय शबरीमाला उच्चतम न्यायालयेनोक्तं यत् तदीय नव न्यायाधीशानां संवैधानिक पीठं केरलस्य शबरीमाला मन्दिरं समेत्य विभिन्न धार्मिक स्थलेष् महिलाभि भेदभाव सम्बद्ध प्रकरणस्य श्रवणं दश दिवसाभ्यन्तरे प्रपूरयिष्यति मुख्य न्यायाधीशस्य न्यायमूर्ते क्रि क्रि कोबडे वर्यस्य अध्यक्षता यूतेन पीठेन इदं स्पष्टी कृतं यत् श्रवणकाले समृत्थित प्रश्ना पूर्णतया वैधानिका भविष्यन्ति खण्डपीठे न्यायाधीश न्यायमूर्ति बीआरगवई न्यायमूर्ति सूर्यकान्तोऽतोपि समाविष्टीस्त